करतारपुरवीथी उपवेशनम् करतारप्रवीथीसम्बद्धविषयेष् विचार विमर्श अद्य अटारी वाघा सीम्नि भारतपाकिस्तानयो द्वितीयचक्रीये उच्चस्तरीयशिष्टमण्डलोपवेशने दृष्टिगंत उपवेशनेऽस्मिन् प्रमुखेष् विषयेष् चचितं यत् भारतं स्वकीय पक्षत एक सेत्निर्माणकार्यरत वर्तते पाकिस्तानेन अपि स्वपक्षत सेतो निर्माणकार्यं कर्तव्यम् येन भारतीयसिख श्रद्धालूनां आवागमनं सुरक्षित सरलञ्च सम्भवेत् तोयप्लवस्थितौ चापि आशंकानिवारणं प्रभवेत् कर्नाटकराज्यम् कर्नाटकराज्यस्य आवासमन्त्रिण एम टी बी नागराजस्य मुम्बई प्रस्थाने सति सत्तारूढप्रशासने अस्थिरिता दृष्टा नागराज येष् षोडशविधायकेष् वर्तते येन विगतसप्ताहे विधानसभाया सदस्यतात पदत्याग कृत आसीत् कर्नाटकस्य मुख्यमन्त्रिणा एचडी कुमारस्वामिना विधानसभायां सहसा घोषणा विहिता आसीत यत् स सदने विश्वासमतप्रस्तावं सुनिश्चेष्यति चन्द्रयानं द्वे भारतस्य सर्वाधिकस्य प्रतिष्ठितस्य चन्द्रमस अभियानस्य अन्तर्गते चन्द्रयानं द्वे इत्यस्य प्रक्षेपणं श्व प्रात भविष्यति इसरो इति भारतीयान्तरिक्षान्संधानसंघटनेन प्रात एकपञ्चाशन्मिनटोत्तर द्विवादने देशस्य सर्वाधिकशक्तिशाली जी एस एल वी मार्क त्रिणि इति प्रक्षेपणयानेन चन्द्रयानं द्वे इत्यस्य प्रक्षेपणकार्य विधास्यते आन्ध्रप्रदेशस्य श्रीहरिकोटा स्थितस्य सतीशधवनान्तरिक्षकेन्द्रे विगत रविवासरात् अस्य अभियानस्य परीक्षणकार्य प्रचलति

राज्यस्य पञ्चविंशतिजनपदेष् चतुर्दशलक्षमिता जना वृष्टिप्रभावेण व्याकृता आपत्प्रस्ताश्च दृश्यन्ते तोयप्लव भूस्खलनाभ्यां अध्ना यावत् सप्तस्थानीयजना मृता सन्ति सेना राष्ट्रियापदोचनबलं राज्यापद्योचनबलसहिता स्थानीयजना जनोद्वारकायेंष् संलग्ना वर्तन्ते पञ्चविशति सहस्राधिकग्राम्यजना आश्रयशिविरेष् शरणापन्ना सन्ति काज्ञीरंगाराष्ट्रियोद्यानस्य अशीतिप्रतिशतं भागं जलमग्नो दृश्यते

नवजोतसिंहेन उक्त यत् तेन स्वकीय पदत्याग जूनमास्य दशमे दिनांके दलस्य तत्कालिकराष्ट्रियाध्यक्ष राहुलगांधिन प्रेषित आसीत् तेन प्रोक्त यत् स पत्रमिदं राज्यस्य मुख्यमन्त्रिणं कैप्टन अमरिंदरसिंह प्रति अपि प्रेषयिष्यति मुख्यमन्त्रिणा अमरिंदरसिंहेन स्वकीये मन्त्रिमण्डले परिवर्तनं विधाय तस्मात्स्थानीय निकाय संस्कृतिकार्य पर्यटनविभागा स्वीकृत्य तं ऊर्जा नवीकरणीयोर्जयो विभाग प्रदत्त आसीत् येन कारणेन स अप्रसन्नचेत अभवत्

पणजीनगरे भारतीयान्ताराष्ट्रियचलच्चित्रमहोत्सवस्य संचालनसमित्या उपवेशनानन्तरं सूचनाप्रसारणमन्त्रिणा प्रकाशजावड़ेकरेण इद विज्ञापितम् तेन इदमपि उक्तं यत् तत्र व्यावसायिक प्रदर्शनी अपि भविष्यति यस्यां चलच्चित्रसम्बद्धा नवीनतमा प्रौद्योगिकी प्रदर्शयिष्यते